प्रधानमन्त्रिणा प्रोक्तं यत् प्रशासनं प्रत्येकस्य नागरिकस्य सुस्वास्थ्याय कृतसंकल्पमस्ति देशे सप्तशत जनपदेष् प्राय द्वि शताधिक षट् सहस्रं जनौषधि केन्द्राणि स्वल्पमूल्येष् औषध वितरणाय संस्थापितानि सन्ति

युवविषयक खेल विभागीय केन्द्रीय मन्त्रिणा किरेन रिजिज़्ना अद्य ऐदम्प्राथम्येन समोयोजितानां खेलो इण्डिया शीतकालिक क्रीडानां शुभारम्भ जम्मूकश्मीरस्य गुलमर्गे विहित मोदीजनौषधि प्रधानमन्त्री नोन्द्र मोदी अद्य श्रव्य दृश्य संचार माध्यमेन जनौषधि केन्द्र स्वामि लाभार्थिभि साकं सम्भाषणं व्यदधात् जनौषधि दिवसम् उपलक्ष्य सम्भाषण क्रमे श्रीमोदी अवादीत् यत् अनया योजनया समेऽपि जना औषध ग्रहणाय क्षमा जाता

प्रधानमन्त्रिणा प्रोक्तं यत् प्रशासनं प्रत्येकस्य नागरिकस्य सुस्वास्थ्याय कृतसंकल्पमस्ति श्रीमता मोदिना उक्तं यत् प्रत्येकस्मिन् मासे कोट्यधिका नागरिका अनया योजनया लाभान्विता जायन्ते वाराणसी पुलवामा देहरादून मुजफ्फरपुर कोयम्बटूर पुणे गुवाहाटीषु विद्यमानां जनौषधि केन्द्राणां स्वामिन लाभार्थिनश्च योजनाया विभिन्न पक्षान् अवलम्ब्य श्री मोदिना समं चर्चां कृतवन्त अपि च तै प्रधानमन्त्री तदीयाभूतपूर्व प्रयासेभ्य समभिनन्दित जनीषधिकद्वाणि ध्यानास्पदमस्ति यत् देशे सप्तशत जनपदेषु प्राय द्वि शताधिक षट् सहस्रं जनौषधि केन्द्राणि स्वत्पमूल्येषु औषध वितरणाय संस्थापितानि सन्ति प्रवर्तमान वित्तवर्षे जनौषधि केन्द्र माध्यमेन नवति कोट्यधिक व्यर्बद रूप्यक मितानाम् औषधानां विक्रयणम् अभवत्

एतद्न्मूलनार्थं सहयोगात्मक भावनाया वश्यकता अमुना सबलमुदीरिता श्री मोदी गतदिने नवदिल्ल्यां समनुष्ठितं इकॉनौमिक टाइम्स वैश्विक व्यापार मञ्च सम्बोधयति स्म तेनोक्त यत् इदानीं सतत विकासार्थं सहयोगस्य परिकल्पनाया वश्यकता विद्यते भविष्यस्य धारत्वेनापि दृष्टिरेषा नूनं लाभप्रदा सेत्स्यति

पञ्च दिवसीय क्रीडा स्पर्धास् प्राय नवशतं क्रीडका स्व स्व क्रीडा कौशलं प्रदर्शयिष्यन्ति